महत्वाधायि कठिन प्रक्रियेयं अद्य रात्रौ एक द्वि वादनयोर्मध्ये विधास्यते एवं भूतं प्रथमं गौरवास्पदं क्षणं साक्षात् नयन गोचरी कर्त् प्रधानमन्त्री नरेन्द्रमोदी बैंगलूरू नगरस्थं इसरो केन्द्र भवनं यास्यति उच्च माध्यमिक विद्यालयानां सप्तति छात्रा अपि दृश्यमिदं साक्षात्करिष्यन्ति एतेषां चयनं चन्द्र मिशन इति विषयमवलम्ब्य राष्ट्रिय प्रश्न मंच स्पर्धा माध्यमेन विहितमासीत्

स्वीय ट्वीट् सन्देशे प्रधानमन्त्रिणोल्लिखितं यत् असौ ऐतिहासिक क्षणं द्रष्ट्मतीवोत्साह पूरितं विद्यते जना अपि दृश्यमिदं दृग्गोचरी कुर्वन्तु इत्यपि प्रोदीरितवान् राष्ट्रपति राष्ट्रपति रामनाथकोविंद अद्य नवदिल्ल्यां आयोजिते एकस्मिन् कार्यक्रमे स्वच्छ भारत अभियाने असाधारण योगदानार्थं प्रस्काराणि प्रदत्तवान् जम्मूकश्मीरस्य वैष्णोदेवी श्राइन मण्डलं सर्वश्रेष्ठ स्वच्छ आइकोनिक प्रस्कारं लब्धवान् रेलमन्त्रालय स्वच्छ महोत्सव पुरस्कार लब्धवान् उपराष्ट्रपति उपराष्ट्रपति एम वेंकैया नायड् अवादीत् यत् भारतदेश कदापि आक्रामकदेश नासीत् भारतदेश कदापि स्वत अन्य देशे आकप्रणं नैव अकरोत्

उपराष्ट्रपति न्यगादीत यत समस्यानां निराकरणं संवाद माध्यमेन भवित्म शक्नोति श्रीनायडू अद्य नवदिल्ल्यां राष्ट्रपति रामनाथकोविंदस्य चयनितभाषणानां द्वितीय संग्रहस्य विमोचनं करोति स्म लोकतन्त्र के स्वर द रिपब्लिशन एथिक पुस्तकयो राष्ट्रपति कोविंदस्य कार्यकालस्य द्वितीयवर्षस्य पंचनवति संबोधनानां संकलनं अस्ति

केरल उच्च न्यायालयस्य मुख्य न्यायाधीशेन श्रीखान पदगोपनीयताया शपथवचनेन प्रतिज्ञापित राजस्थान कुपोषणं राजस्थाने क्पोषण निवारणार्थं अन्य राज्यै सह पोषणाभियानं अन्तर्गते पोषण माह आमन्यते अस्माकं वार्ताहरानुसारेण राज्यत ग्राम स्तर पर्यन्तं अनेक कार्यक्रमाणां आयोजनं भवति

प्रूषाणां उपान्त्यचक्र स्पर्धा श्व प्रात काले भविष्यति प्रथम उपान्त्य चक्रे स्पेनदेशस्य राफेल नडाल इटलीदेशस्य मेततियो बेरेतेनी इत्यनेन सह स्पर्धिष्यते

इति वार्ताः